क्व्वीय मन्त्रिमण्डलप्र वित्त आयोगस्य अवधि एकादशमासपर्यन्तं अग्रस्तिरित महाराष्ट्र विधानसभाया सामयिकाध्यक्षणकालीदासकोलम्बकरणनवनिर्वाचिता विधायका प्रतिज्ञापिता

आन्ध्रप्रदृष्तिय श्रीहरिकोटाया सतीश धवन अन्तरिक्षक्व्वित् एतक्ष्मि उपग्रहाणा प्रक्षप्पि प्रात प्राय सार्धनव वादन पी एस् एल् वी सी सप्तचत्वारिशत् इति प्रक्षण्णियानात् सम्पादितम् पी एस् एल् वी प्रक्षण्णियानस्य नवचत्वरिशत्तमं प्रक्षण्णिक्रमोऽयम् अवर्तत उपग्रहाणा सफलप्रक्षण्णार्थं प्रधानमन्त्रिणा इसरो वैज्ञानिका वर्धापिता

एतदनु एतत्वित्तवर्ष अग्रिमवर्षस्य ऑक्ट्रबर त्रिंशदिनांक यावत् प्रवर्तयिष्यत सम्भव्यत आयोग शनिवासर अंतरिम प्रतिवहित् प्रस्तोष्यति यस्मिन् अप्रिम वित्तवर्षाय करव्यवस्थापन पद्धत नियम विविरणं भविता

राज्यपाल शिवस प्रिमुख उद्धव ठाकर छिव सायं मुख्यमन्त्रिपदाय शपथवचना प्रतिज्ञापथिष्यता शिवसप्रिणन् सी पी कांप्रस्डिलाना संयुत्या गतसायं उद्धव ठाकरप्रिख्यमन्त्रिपदाय चित आसीत अनन्तरं संयृति नूत्रिभ राज्यपालं सम्मिल्य तदीय महाराष्ट्र विकास अघाडि इति संघटनम् राज्य अशासन विरचनायं आमन्त्रयित्म निवर्द्रिम सममध्य संयुतिदलं समर्थनकारिणां षट्षष्टि विद्यायकानां समर्थनपत्रमपि राज्यपालाय समर्पितम

विशिष्टस्थानप्रदायकस्य सप्तत्यधिक त्रिशतं संख्याकस्य अनुच्छिक्वि अपसारणानन्तरं राज्य द्ररापादित्व ी आतंक्याक्रमण्ड ी साम्प्रतं यावत् त्रय सुरक्षाभटा सप्तदश नागरिका एव मृत्युम्पगता रक्षामन्त्री लोकसभायां प्रश्नं समुत्तरन् वक्तव्यमिदं प्रकाशितवान् अमुनोक्त विगता ्य कतिपयवर्षेभ्य आतंकवादि घटनास् नैयून्यं दृग्गोचरीभूतम्